जम्मू संभागे स्थिति पूर्णतया सामान्या वर्तते

अद्य श्रीनगरे तेन वार्ताहैर सूचितं यत् जम्मू कश्मीर लद्दाख क्षेत्रेषु शान्तिपूर्णतया ईद समारोहानन्तरं प्रतिबन्धा स्थिलिभूता रोहित कंसलेनोक्तं यत् जम्मू क्षेत्रे कोऽपि प्रतिबन्ध नास्ति अपरत्र कश्मीरस्य केषचित् क्षेत्रेष प्रतिबन्ध प्रचलित तेन भणितं यत् जम्मू कश्मीर लद्दाख जनपदेष् स्वतंत्रता दिवस समारोह अभ्यास प्रचलित राज्यपालस्य प्रवक्त्रा भणित यत् चिकित्सालयेषु चिकित्सा सुविधा उपलब्धा

न्यायालयेनोक्तं यत् असौ स्थिति सामान्य भूता पर्यन्त प्रतीक्षां करिष्यति प्रकरणमिदं च द्रि सप्ताहानन्तरं श्रवणं विधास्यति जम्मूकश्मीर जम्मूकश्मीर आरक्षिदलेन भिन्न सामाजिक सञ्चार सेवा प्रदातृभ्य प्रोक्तं यत् ते भयातंक प्रसृत कर्तृभ्य राज्यस्य स्थिति विषये धूमिल प्रतिरूप कर्तन् विरूद्वय समुचितं दण्डविधानमाचयेय् प्रशासनेन पृथक्तावादि नेतारं सैयद अली गिलानीं समेत्य अष्ट जनानां ट्वीटर सब्जालेष कार्याचरणार्थम् अनुशंसा प्रकटिता जम्मू कश्मीर रक्षिदलेन वार्ता खण्डिता यत् केन्द्रीयारक्षिबलस्य जम्म कश्मीर रक्षि दलस्य वीराणां च मध्ये संघर्ष सब्जात एकस्यां विज्ञप्यां रक्षिदलेन प्रोक्तं यत एषा असत्या निराधारा च वर्तते अत्रान्तरे प्राशासनिक सूत्रै निगदितं यत् कश्मीरोपत्यकायां सब्चार कार्मिकाणां सौकर्याथं प्रशासनेन सब्चार केन्द्रमेकं स्थापितम् जम्मू कश्मीरस्य विशेष स्थानं समापनानन्तरमपि पाकिस्तानं सत्यमिदं अस्वीकृतम् त्रिप्रा त्रिप्रायां प्रतिबन्धित आतंकि संघटनस्य एन एल एफ टी सवीर देव वर्मा गुल्मस्य अष्टाशीति आतंकिभि अधकाई जनपदस्य अम्बासायां मुख्यमन्त्रिण विप्लव कुमार देवस्य उपमुख्यमन्त्रिण जिशून देव वर्माया अध्यक्षतायाम् आत्मसमर्पण विहितम् जि प्राक् रविवासरे एन एल एफ टी एस डी त्रिपुरा प्रशासनस्य केन्द्र प्रशासनस्य च मध्ये त्रि पक्षीय सन्धि ज्ञापनम् हस्ताक्षरितम् मुख्यमन्त्रिणा आश्वासनं प्रदत्तं यत् सर्वे संकल्पा प्रपूरिष्यन्ति तेनोदीरितं यत् त्रिप्रा प्रशासनं राज्यस्य जनजातीय जनानां हिताय सर्व सम्भवोपाया विदधाति उच्चतम न्यायालय असम उच्चतम न्यायालयेन आदेश एक प्रसारित यत् राष्ट्रिय नागरिक पिव्जकाया अन्तिम सूच्या विहिन नाम सूची मासस्य एकत्रिशत् तारिकां साक्षात् प्रणाली माध्यमेन प्रकाशयेय् प्रधान न्यायाधीशस्य रब्जन गोगोई न्यायमूर्ते आर एफ नरीमनस्य पीठेन व्यवस्था प्रकाशिता यत आधार विवरण समं असम राष्ट्रिय नागरिक सुची विवरण व्यवस्था प्रभावि भवेत सिक्किम सिक्किम राज्ये विपक्षि डेमोक्रेटिक फ्रन्ट दलस्य त्रयोदशेष् दश विधायका भारतीय जनता पार्टीति दले समाविष्टा